केन्द्रशासिते जम्मू कश्मीर राज्ये अद्य सम्पत्स्यमाणाय जम्मू कश्मीर जनपद विकास निर्वाचनाय सर्वाः सज्जताः सन्ति सम्पूरिताः प्रधानमन्त्री नरेन्द्रमोदी द्यः ब्रिटिशप्रधानमन्त्रिणा बोरिस जॉनसेन सह दुरभाषद्वारा चर्चा अकरोत्

भारतं कोरोना इति वैश्वकसंक्रमणं प्रति प्रवर्तमाने युद्धे अनारतं साफल्यम् अधिगच्छति प्रत्यावाप्तिमिति षड् पञ्चदशमलवोत्तर त्रिनवति प्रतिशतं संवृत्ता

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीकुर्वन्तु मुखावरंक सन्धारयन्त सामाजिकदौर्य परिपालयन्त् पाणिपाद च यथासमय प्रक्षालयन्त

प्रधानमन्त्री कार्यालयान्सारि एतादृश्न समये यदा देश कोविड्संक्रमणनिवारणो पचाराणां प्रयत्ना अन्तिमे चरणे प्रविष्टाः प्रधानमन्त्रिणः एषा यात्रा वैज्ञानिकैश्व सह चर्चाः महत्वपूर्णाः भविष्यति सर्वप्रथमं प्रधानमन्त्री अहमदाबादम् अनन्तर पणेनगर तथा च सर्वान्ते हैदराबादनगर प्राप्स्यति

अद्य प्रथमे चरणे जम्मू सम्भागस्य अष्टादश कश्मीर सम्भागस्य च पञ्चविंशति जनपद् निर्वाचनक्षेत्रप् निर्वाचनानि अनुष्ठास्यन्ते राज्यस्य निर्वाचनायुक्तेन केके शर्माणा स्पष्टीकृतं यत् एतन्निर्वाचनानि अष्टचरणेष् सम्पत्स्यन्ते

भारतेन ब्रिटेनदेशेन च सहभागिता वर्थित्म् इच्छाः प्रकटिताः उभौ नेतारौ उभयोः देशयोः मध्ये कोविड नवदशमहामार्याः सूच्यौषधस्य विनिर्माणे उत्पादने च सहयोगस्य अपि चर्चाम् अकुरुताम्

अस्मिन् जालपुटे राष्ट्रियेपु अन्ताराष्ट्रियेपु च स्तरेष् सर्वकारद्वारा जलवाय्परिवर्तन सम्बद्धानां विषयाणाम्परि क्रियमाणानां कार्याणां सूचनाः उपलब्धाः भविष्यन्ति

इमे कोरोनामहामार्याः कारणात् अष्टमासेभ्यः पिहिताः आसन् स्वास्थ्यसचिवः अमिताभ अवस्थी प्रावोचद यद छात्रै स्वकीयस्वस्थतायाः प्रमाणपत्र देये भविष्यति